कोविड सन्देश प्रिया श्रोतारःकोविड ऊनविंशति इत्यस्याःसंक्रमणेवृद्धिः पुनःजायते एतदर्थनिवेद्यतेयत्असावधानतांमाव्यवहरन्तु अष्टादश वर्षात् अधिकवयोभिःसर्वैःजनैःसूच्यौषधंस्वीकरणीयम्

स्वास्थ्य परिवार कल्याण मन्त्रालयस्यसचिवेनलव अग्रवालइत्यनेनप्रतिपादितंयत् द्वादश राज्येषुकोरोना संक्रमणस्यएकलक्षमितादपिअधिकानि सक्रिय प्रकरणानिसन्ति इमानिराज्यानि महाराष्ट्रं कर्नाटकः केरलः उत्तर प्रदेशः राजस्थानःआन्ध्र प्रदेशः गुजरातःतमिलनाडुःछत्तीसगढ़ःपश्चिम बंगालः बिहारः चसन्ति

प्रधान वैज्ञानिक परामर्शदाता विजय राघवनःप्रोक्तवान्यत्उपलब्धानिसूच्यौषधानिकोरोना विषाणोः विदयमान स्वरूपंविरुध्यअतिप्रभावीनिसन्ति सःअवोचत्यत्विषाणोःनूत नाःप्रकाराः अपि अखिलेहिविश्वेप्रकाशेआगमिष्यन्ति अनेनसंक्रमणस्यअधि कंप्रसारणंभविष्यति सःप्रोक्तवान्यत्अयंएकीभूयकार्य करणस्यसमयःवर्तते भारतंविश्वं च अस्याःमहामार्याःम्क्ताःभविष्यन्ति तेनप्रोक्तंयत्महामारींरो द्धंम्खावरकस्यधारणं सम्चित दूरतायाःपरिपालनं च अति आवश्यकेस्तः

रसायन उर्वरक मन्त्रीडीवी सदानन्द गौडाउक्तवान्यत्राज्येभ्यःकेंद्रशासित प्रदेशेभ्यः च गतमासस्यएकविंशति दिनांक पर्यन्तंरेमडेसेविर इत्यस्यओषधस्यपञ्चाशत्सहस्राधिक चत्र्रिशल्लक्षमात्राणिआवण्टितानि

गतदिनेसमीक्षोपवेशने रसायन उर्वरक मन्त्रिणारेमडेसेविर ओषधेः उत्पादन क्षमतांप्रतिमासम्अष्टत्रिंशल्लक्षमिताद्विवध्यत्रिलक्षोत्तर एककोटिमितंप्रतिमासंकर्तुंसप्त विनिर्मातृणांप्रयासाः अपि प्रशंसिताः सःउक्तवान्यत्अनेनदेशेओषधीनाम्उपलब्धतायांवृद्धिःभवि ष्यति भारतीय औषध महानियन्त्रकः डॉ सोमानीसंसूचितवान्यत्आपणेषुऔषधानांपर्याप्ता उपलब्धता अस्ति सःप्रतिपादितवान्यत् ओषधि विभागेन केन्द्रीय ओषधि मानक नियंत्रण संघटनेन च ओषधीनामुपलब्धतायाःनिरीक्षणंअनवरतंकरिष्यते

अत्रब्रिटेन देशस्यप्रधानमन्त्रिणाबोरिस जॉन्सन इत्यनेनसःवार्तायां डॉ जयशंकरःआश्वासनंप्रदत्तवान्यत्सःब्रिटेन देशीय विदेशमन्त्रिणाडोमिनिक राबइत्यनेनसःत्रिंशदधिक द्विसहस्राब्दस्यरूपरेखांअग्रेसरिष्यति

इदानीम्अयंमन्त्रलायःविभि न्नानां सामाजिक सुरक्षाणांयोजनानांलाभार्थीनांश्रमिकाणाम् आधार प्रपत्रेण सम्बन्धित सूचनानांप्राप्तिःकर्तुंशक्यते केन्द्रीय श्रम वृत्तिसम्बन्धि मंत्री संतोष गंगवारःस्पष्टीकृतवान्यत् आधार प्रपत्रस्यअभावेकस्यचिदपिश्रमिकस्य सामाजिक स्रक्षा योजनायाःलाभैःवञ्चनं न करिष्यते